स्वीडन देशीयो राजा कार्ल षोडश ग्रस्ताफ राज्ञी सिल्विया चाद्य नवदिल्लीं सम्प्राप्न्त काठमाण्डौ अन्वर्तमानास् त्रयोदशस् दक्षिणैशिया क्रीडास् प्रुष वॉलबॉल क्रीडा शृंखलाया निर्णायके चक्रे श्वो भारतं पाकिस्तानेन समं संयोत्स्यते

उक्तं निर्घण कृत्यम् अभिलक्ष्य हय इदम्प्रथमतया स्वीय प्रतिक्रियां व्यंजयन् राज्य मुख्यमन्त्री केचन्द्रशेखर राव द्र्त न्यायालय विषयकं निर्णयं श्रावितवान् सहैव मृतकाया परिवार जनान् प्रति हार्दिकीं समवेदनां प्रकाशयता श्रीरावेण प्रशासन पक्षतः तेषां सर्वविधं साहाय्यं प्रतिश्र्तम्

अत्रान्तरे तत्र द्वितीय तृतीय चरणात्मक मतदानेभ्य प्रचाराभियानानि तीव्री भूतानि सन्ति

श्रीकोश्यारी गतिदवसे तत्रत्य विधासनसभाया संयक्तोपवेशनं सम्बोधयति स्म

अधिकारिभि तिरूवल्लुरे थ्रथुकुड्यां रमानाथपुरे चेति त्रिष्ट जनपदेष्ट अद्य विद्यालयानां पिधानमादिष्कम् एवमेव पुद्दुचेर्यामपि सर्वे विद्यालया अद्य पिहिता स्थास्यन्ति

स्वीय षड् दिवसीय यात्रावधौ इमौ दम्पती दिल्ल्याम् आधिकारिक कार्यक्रमान् अतिरिच्य मुम्बईम् उत्तराखण्डं चापि प्रयास्यतः